प्रधानमन्त्रिणा नरेन्द्रमोदिना देशस्य कृषका समाश्वासिता यत् नूतनकृषकविधेयकं कृषकाणां लाभाय एव विनिर्मितम् केन्द्रशासिते जम्मूकश्मीरे प्रदेशे द्वितीय र्णा निर्वाचनाय सम्पूचरणस्य सन्ति सज्जा

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य संकल्पं स्वीक्वन्तु मुखावरंक सन्धारयन्त सामाजिकदौर्य परिपालयन्त् पाणिपादं च यथासमयं प्रक्षालयन्तु

कृषकेभ्य एकस्मिन आवाहनपत्रे कृषि सहयोग कृषक कल्याण मन्त्रालय सचिव सञ्जय अग्रवाल कृषकान् अद्य त्रिवादने बार्तार्थ विज्ञानभवनम् आहूतवान् कृषिमन्त्री नरेन्द्रसिंहतोमर प्रावोचत् यत् कृषकनेतार वार्ताभ्य समाहूता ध्येयास्पदं वर्तते यत् कृषका नवीन कृषि नियमानां विरुद्ध आन्दोलनप्रदर्शनं कुर्बन्तः सन्ति प्रधानमन्त्री देव दीपावली प्रधानमन्त्रिणा नरेन्द्रमोदिना देशस्य कृषकेभ्य समाश्वासितं यत् नूतनकृषकविधेयकं कृषकाणां लाभाय एव विनिर्मितम् सर्वकार न केवल कृषकेभ्य अवसरप्रदानमेव वाच्छति प्रत्युत तेभ्य सुदृढ आपणब्यवस्था प्रदानमपि समीहते सर्वकार आत्मनिर्भरभारतम् इति लक्ष्यमुदिश्य कृषकाणाम् हितदिशि विश़द्धमनसा कार्य कुरुते प्रधानमन्त्री निजसंसदीयक्षेत्र वाराणस्यां जनसभा संबोधयति स्म अत्रावसरे असौ न्यगादीत् यत् विपक्षिदलं कृषकान् भ्रामयति

अत्रावसरे वाराणस्यां प्रधानमन्त्री नैकेष कार्यक्रमेष् देवदीपावलि उत्सवे चापि सहभागं अकरोत्

अद्य जम्मुकश्मीरे जिला विकास परिषद द्वितीयचरणाय निर्वाचनानि भवन्ति सममेव पञ्चायत उपनिर्वाचनानि अपि आयोज्यन्ते

अष्टचरणात्मकस्य अस्य निर्वाचनक्रमस्य इदं द्वितीयं चरणम

उपराष्ट्रपतिः एम वेंकैव्या नायडुः सम्मेलनस्य आध्यक्ष्यम् अभजत्

कोरोना देशे कोविड नवदश महामार्या स्वस्थतामिति त्रिनवप्ति दशमलव अष्ट प्रतिशन्मिता संजाता विगत चतुर्विशतिहोरास् त्रयखिंशदल्तर त्रिशताधिक पंचचत्वारिशत् सहम्रजना स्वस्थीभृय गृहं प्रति गता स्वास्थमन्त्रालयानुसारं स्वस्थीभृतानां संख्या सप्तचत्वारिशत्सहम्राधिक अप्टाशीति लक्षाधिका जाता

इति वार्ता